कोलकाता नगरस्य साल्टलेक क्रीडाङ्गणे भारत बांग्लादेशयोर्मध्यै ई वर्गे समायोजिता फीफा विश्वचषकपादकन्द्कार्हता स्पर्धा अनिर्णीता जाता केन्द्रम्राज्यानिखाद्यान्नम् केन्द्रेण राज्यानि परामृष्टानि यत्तानि वर्षेडस्मिन् दिसम्बर मासपर्यन्तं विशिष्य पर्वावधौ राज्य जनपद स्तरयोः पलाण्ड् द्विदल खाद्यतैल तैलबीजानां प्रभूत विक्रेतृभिः व्यापारिभिः आयातकैः निर्यातकैश्व समम् अनारतम् उपवेशनानि आचरेयूः द्यो नवदिल्ल्याम् उपभोक्त मन्त्रालयीय सचिवस्य आध्यक्ष्ये खाद्यान्न ग्णवत्ता मूल्यादि निर्धारक समूहेन समाकारिते अष्टादशे उपवेशने निर्णयोऽयं विहितः

कश्मीरस्य क्षेत्रीयायुक्तेन बसीर अहमद खानेन एतत् सम्दीरितम्

सञ्चारमाध्यम कौशलम् केन्द्रीय कौशल विकासोद्यमितामन्त्रिणा महेन्द्रनाथ पाण्डेयेन प्रोक्तं यत् सब्चारमाध्यम मनोरब्जन क्षेत्रेष् नव संख्याकेष् नगरेष् चतुर्दशमितानि अधिकृतानि विश्व कौशल भारतकेन्द्राणि स्थापयिष्यन्ते एतानि नगराणि सन्ति चण्डीगढम् चेन्नई दिल्ली हैदराबादम् इन्दौरम् मुम्बई पुणे शिलौंगम् त्रिवेन्द्रम् च स्मृति ईरानी केन्द्रीय मन्त्री स्मृति ईरानी अब्रवीत् यत् सम्पूर्णेडपि देशे विशेषेण महिलानां बालानां च कृते अधिनियमित नियमानां प्रवर्तन ं समाह्वानकरमस्ति मुम्बय्याम एकस्मिन वैयक्तिक सव्चारमाध्यमीय कार्यक्रमे सम्भाषमाणया तया प्रोक्त यत् मातृत्व पितृत्वावकाशेष् संवर्धनं विधाय प्रशासनेन शिश् निभालन विषये पदक्षेपः विहितोऽस्ति

प्रदृषणरोधि याचिकायाः एकस्याः वादश्रवणं विदधता राष्ट्रिय हरित प्राधिकरणाध्यक्षस्य न्यायमूर्तेः आदर्श कुमारस्य आध्यक्ष्ययुतेन खण्डपीठेनैकेन निर्देशोऽयं प्रदत्तः

चिदम्बरम् अत्र प्रकरणे संलिप्पि सन्देहकारणात् अस्य मासस्य सप्रदश दिनाइकात् न्यायिक निग्रहणे वर्तते बैडमिंग् कोलकाता नगरस्य साल्टलेक क्रीडाङ्गणे भारत बांग्लादेशयोर्मध्यै ई वर्गे समायोजिता फीफा विश्वचषकपादकन्दकार्हता स्पर्धा अनिर्णीता जाता